भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्र्यस्य सङ्कल्पं स्वीक्वन्त् मुखावरकं सन्धारयन्तु सामाजिकदौर्य परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्त् अथ वार्ता विस्तरणि प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अद्य ग्जराते उच्चन्यायालयेन आयोक्ष्यमाणं तदीयं हीरक जयन्ति समारोहं सम्बोधयिष्यति दृश्य श्रव्य तन्त्र प्रणाल्या असौ सार्ध दशवादने स्वीयोद्रोधनं प्रारप्स्यते अत्रावसरे प्रधानमन्त्री एकस्य प्रैषपत्रस्यापि विमोचनं करिष्यति

अत्र समारोहे ग्जरातस्य विधिमन्त्री उच्चन्यायालयस्य ग्जरात उच्चन्यायालयस्य च न्यायाधीशा राज्यस्य मुख्यमन्त्री समेता नैके गणमान्या सम्पस्थास्यन्ति

अवधेयं यत् तत्र केन्द्रशासिते प्रदेशे विशिष्टस्य अन्च्छेदस्य अपाकरणानन्तरं इयं सेवा स्थगिता आसीत् एतस्या सेवाया प्रवर्तनाय द्वाविंशति देशेभ्य आप्रहसमागत आसीत् वित्तमन्त्री केन्द्रीय मन्त्री निर्मला सीतारमण अद्य ग्वाहाट्यां समायोक्ष्यमाणे चाह बगीचा धन प्रस्कार मेलके सहभागं करिष्यति मेलकस्य इदं तुतीयं चरणं भविता अत्र कार्यक्रमे चाह उद्यानेन सम्बद्वेभ्य प्राय सार्थ सप्त संख्याकेभ्यो जनेभ्य असम प्रशासनं साहाव्य राशिं प्रदास्यति तत्रैव वित्तमन्त्री अत्र कार्यक्रमे मुख्यातिथित्वेन सहभागं विधास्यति कार्यक्रमे असमस्य मुख्यमन्त्री सर्वानंद सोनोवाल वित्तमन्त्री हिमन्त बिस्वा सरमा चापि उपस्थास्यत